अद्य समग्रे राष्ट्रे कोरोनामहामार्या सूच्यौषधि वितरणाभ्यास सूष्ठतया संचालित

भवन्तोऽपि अस्माभि सह सुरक्षाया उपायत्रयस्य सङ्कल्पं स्वीकुर्वन्तु मुखावरकं सन्धारयन्तु सामाजिकदौर्यं परिपालयन्तु पाणिपादं च यथासमयं प्रक्षालयन्तु

अप्रे तेनोक्तम यत प्रबन्धनम त् नवाचारस्य सम्पूर्णताया समावेशनस्य च व्यापक अवधारणा धारितमस्ति सम्प्रत्यपि ये के पि जना विकासलाभेन अस्पृष्टा सन्ति ते ़ पि अस्याम् यात्रायां सम्मिलिता स्युः इति एतदर्थं अस्माभि प्रयासो विधेय प्रधानमन्त्रिणा निगदितं यत् भारतीयप्रबन्धनसंस्थानेभ्य शिक्षां लव्धवत्य लव्धवन्तश्च प्रातिभायुक्तजना राष्ट्रे राष्ट्रान्तोऽपि च ब्रॉड इन्डिया इत्याख्यां सशक्तां राष्ट्रछविं वरिवर्धयिष्यन्ते अवसरेड़स्मिन् प्रधानमन्त्रिणा भणितं यत् त्मनिर्भरराष्ट्रस्य निर्माणत्वेन स्थानीयोत्पादा कथं वैश्विका भवेय् इत्यपि प्रबन्धनकौशलेनैव संभवति स्टार्टअप्स इत्याख्यस्य नवोद्योगस्य च संभावना कृषित अन्तरिक्षं यावत् अस्ति

अवसरेड़स्मिन श्रीमोदिना ओडिया भाषया एव राज्यवासिभ्य नववर्षस्य वर्धापनानि प्रदत्तानि

अमुना नवदिल्यां वार्ताहरान् सम्बोधयन् संसूचितं यत् सूच्यौषधे वितरण देहल्यामेव न अपित् सर्वत्र विना श्ल्कं वितरिष्यते सूच्यौषधाभ्यासस्य निरीक्षणावसरे एकस्मिन् चिकित्सालये इदमपि उक्तं यत् सुच्यौषधे सुरक्षा अपि च प्रभावकारिता विषये जना सकारात्मका भवन्त् इत्यपि अपेक्षितम तेन यतोहि अस्माकीनं शासनं सृच्यौषधे स्वीकारात्पूर्वं सर्वविधसज्जानां परिक्षणप्रक्रियां दृढतया अनुसरति अतोड़त्र न कथ्चित् संशय जनेष् स्यात्

अस्य अभ्यासस्य मुख्योदेश्यं सूच्योषधिप्रदानसम्बद्धयोजनाया सिद्धतानिरीक्षणं वर्तते

विगत चत्र्विंशति होरास् कोरोनामहामार्या अभिनवप्रकरणानि नवदशस्रहसाणि अड़कितानि इत्थं अस्या स्वस्थतामिति अभिवर्घ्य षष्णवति दशलमव एकं द्वे प्रतिशिन्मिता संजाता अखिलदेशे प्रतिदिनं पंचदशलक्षमितं कोरोनापरीक्षणं जायमानं वर्तते

यदि कश्चन सेवाकाले एव दिव्यांगत्वम् प्राप्नोति चेत् तस्यै तस्मै वा सेवेयं प्रदास्यते एतस्योद्वोषणा ह्यः केन्द्रिय राज्यमन्त्रिणा जितेन्द्र सिंहेन कृता

अद्य देहल्यां वार्ताहैर संभाषयन् तेनोक्तम् यत् विश्वस्य प्रमुखनेतृणां लोकप्रियताया समाकलनकर्तृणा अमेरिकादेशीयया संस्थया घोषितं यत् श्रीमोदिन स्वीकार्यता प्रतिशतांकेष् पंचपंचाशतोड़पि अधिका वर्तते तेन अप्रे उक्तम् यत् श्रीमोदी एक दुद्रष्टा देशोन्नत्यै च सुनिश्चित विचारयुक्तश्च अस्ति

भारदृष्ट्या वर्षेड़स्मिन् पंच चतुर दशमलवोत्तर अष्टप्रतिशतम् अधिकमस्ति

अधीक्षक िरक्षिणा मनोजपाटिलेन उक्त यत् अपहृत्सु द्विशतशिश्ष् सप्तसप्तति शिशव प्नराप्ता येष् तादृशा सप्तचत्वारिशत् बाला अन्विष्टा येषां विलोपप्रकरणानि पंजीकृतान्येव नासन् श्रीपाटिलेन इदमपि प्रतिपादितम् यत् सम्पर्कविच्छिन्नास् दशाधिकद्विशतोत्तरैकसहस्रमहिलास् एकविशोत्तर षड्शतसंख्यका महिला चत्र्शत्सु प्राय पुरूषेष् एकनवति संख्यका पुरूषा अपि अन्विष्टा इति शोकसन्देश राष्ट्रपतिना श्रीरामनाथकोविंदेन प्रधानमन्त्रिणा नरेन्द्रमोदिना च कांप्रेसदलस्य वरिष्ठ नेतु श्रीबूटासिंहस्य निधने गढ्वर शोको व्यक्त राष्ट्रपतिना स्वट्वीटसन्देशे उक्तं यत् श्रीसिंहस्य निधनात् राष्ट्रोब्यं एकेन उत्कृष्ट प्रशासनिक अनुभवयुक्तेन नेत्रा विरत अभवत्